प्राप्स्यन्ति द्वादशकांग्रेसविधायका मन्त्रिपदम् मन की बात प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना ह्य मन की बात कार्यक्रमे भणितं यत् दैशिका समेऽपि नागरिका आत्मनिर्भरा स्वावलम्बिन देशाभिमानिनश्च भवेय् आकाशवाण्या मन की बात कार्यक्रमस्य षष्टितमं संस्करणं सम्बोधयता अमुना जना समाकारिता यत्ते राष्ट्रनिर्माणदिशि रचनात्मकं कार्य विदध्यु महाराष्ट्रमंत्रिमण्डलविस्तार महाराष्ट्रे मुख्यमन्त्रिण उद्धवठाकरे इत्यस्य नेतृत्वयुतस्य महाविकास अगाडी प्रशासनस्य मन्त्रिमण्डलीय विस्तार अद्य भविष्यति शपथग्रहणसमारोहश्च अद्य सायं मम्बय्या विधानसभापरिसरे आयोजयिष्यते मन्त्रिमण्डलस्य प्रप्रथमेऽवसरे शिवसेनाराष्ट्रवादी कांप्रेसदलयो प्रत्यैकं विधायकेभ्य त्रयोदशविधायकेभ्य कांप्रेसस्य च दशविधायकेभ्य मन्त्रिपदस्य शपथवचन कार्ययिष्यते उद्ववठाकरे इत्यनेन नवम्बर मासस्य अष्टाविशत्यां षण्मन्त्रिभिस्साकं मुख्यमन्त्रिपदाय शपथवचनं स्वीकृतमासीत्

अद्य प्रात सार्धसप्तवादने तत्रत्य उपराज्यपाल एडमिरल डी के जोशी केन्द्रीयस्वास्थ्यपरिवारकल्याणराज्यमन्त्री अश्विनीचौबे च राष्ट्रियध्वजारोहणं विधास्यत सुभाषमेलकसमिति स्वराजद्वीप अवसरेऽस्मिन् मोटरबाइक इति द्विचक्रिकासंचालनं समेत्य सांस्कृतिककार्यक्रमाणाञ्च आयोजनं करिष्यति